राष्ट्रिय राजमार्गेष् गमनागमनाय फास्टैगाख्या द्रुतगामी चिटिका अद्य मध्यरात्रित अनिवार्या

संयुक्तराष्ट्रेण म्यामां देशीयेषु प्रमुखनगरेषु कृतबलप्रयोगे चिंता प्रकटिता

अस्मिन्नवसरे एकस्मिन् ट्वीट सन्देशे प्रधानमन्त्रिणा नरेन्द्रमोदिना पदक्षेपोऽयं प्रशंसित तेन भणितं यत् प्रक्रमोऽयंम् आत्मनिर्भरर्ताया दिशि महत्वपूर्णो वर्तते अनेन आंकिकीय भारत कार्यक्रमे सहायता भविष्यति अपि च नवाचारकर्तुम्यो निजी सार्वजनिक क्षेत्रेभ्यो अनुसन्धानसंस्थाभ्यश्च नैका अवसरा उपलब्धा भविष्यन्ति एवञ्च जीविकायै अपि नूतनावसरा उपलब्धा भवितार

साम्प्रतं यावत् पञ्चाशीति सहस्राधिक द्वि अशीति लक्षसंख्यका जना सूच्यौषधम् प्राप्तवन्त विगते अहोरात्रे एकविंशति सहम्रसंख्यका जना सूच्यौषधम् आप्तवन्त अपि च ऊनविंशति सहम्रजना कोविड व्याधे स्वस्थीभूता अभवन् अनेन स्वास्थ्यम् आप्तवतां जनानां प्रतिशतता सप्तनवति दशमलवोत्तर द्वि नव मिति संवृत्ता अपि च रोगीणां संख्याया प्रतिशतता एकदशमलवोत्तर द्वि अष्ट मिति जाता

मैक्सिको देशेन भारतं प्रति सूच्यौषधस्य विशतिलक्षमात्राणाम् अध्यर्थना कृता आसीत् येष् चतुर्णवत्यधिक चतुर्लक्ष मात्राणा प्राप्ति श्व पर्यन्त भविता म्यामां संरामहासचिव संयुक्तराष्ट्रस्य महासचिवेन एंतोनियो ग्तेरेसेन म्यामां देशस्य स्थितौ गभीरा चिंता प्रदर्शिता तेन देशस्य प्रमुखनगरेष् सैनिकानां कवचाच्छादितै वाहनै सह अतिरिक्त आरक्षिबलानां वरिवर्धमानायां संख्यायामपि चिन्ता प्रकटिता परं जनानां विरोधोऽपि वरिवर्धमान अस्ति संयुक्तराष्ट्र महासचिवेन सार्वकारिक अधिकारिणां सामाजिक कार्यकर्तणां संचारमाध्यमानां प्रतिनिधीनां च निग्रहणस्य सहैव आन्तर्जालीय संचारसेवादीनामुपरि च कृतप्रतिबन्ध चिन्तनीय इति उक्त

तेनोक्तं यत् म्यामां देशे घटिताया बलात् सत्ताच्य्तिकरणात् असमक्षेत्रस्य परियोजना दृष्प्रभाविता न भविष्यन्ति स ग्वाहाट्यां पूर्वीय क्षेत्रोन्मुखी नीति इत्यस्मिन् कार्यक्रमे वदति स्म अस्मिन् अवसरे तेन प्रोक्तं यत् भारत जापान देशयो मध्ये सम्बन्धा लाभप्रदा भविष्यन्ति विदेशमन्त्रिणा डॉ एस जयशंकरेण जापान देशस्य राजदतस्य साकं गुवाहाट्यां खरगुली क्षेत्रे प्रवर्तमाना जलापूर्ति परियोजना अपि निरीक्षिता राजनाथगणतन्त्रदिवस समारोह रक्षामन्त्री राजनाथ सिंह अद्य गणतन्त्रदिवसस्य समारोहसम्बद्धा पुरस्कारा प्रदत्तवान्

सममेव तेन सैन्यबलानाम् प्रयासा अपि अभिनान्दिता एतस्मिन् अवसरे तेन स्वसम्बोधने प्रतिपादितम यत् अनेकतास् एकता भारतीय लोकतन्त्रस्य विशिष्ट लक्षणो वर्तत इति प्रम मन की बात प्रधानमंत्री नरेन्द्रमोदी मासस्यास्य अष्टविंशति दिनांके आकाशवाणीत प्रसार्यमाणस्य मन की बात कार्यक्रमस्य चतुर्सप्ततितमेन अंक माध्यमेन विदेश देशान्तरिकै जनै सह स्वमतं प्रकटयिष्यति एकस्मिन् ट्वीटालेख्ये तेनोल्लिखितं यत् जना अस्मै कार्यक्रमाय प्रेरक घटनानां प्रसंगा चर्चेयु जनवरी मासीयेऽस्मिन् कार्यक्रमे श्रीमोदिना कला संस्कृति पर्यटन कृष्याधारिता नवाचारीया विविधा विषया चर्चिता

भारतीय पटसन निगमेन अस्मै सत्राय एकसहम्र मिट्रिक टनात्मकं प्रामाणिक शण बीजानां वाणिज्यिक वितरणाय विगते एव वर्षे राष्ट्रिय बीज निगमेन सह सन्धौ हस्ताक्षरिता आसन् श्रीमत्या ईरानिना आराष्ट्रे शणकृषकाणां सहायतायै संघीयसर्वकारस्य कार्याणामुल्लेख कुर्वन्ती कथितं यत् शणनिर्मित वस्तूनां प्टकीकरणस्य सर्वकारस्य निर्णयेन चत्र्लक्षाधिका कृषका प्रत्यक्षेन लाभान्विता भविष्यन्ति इति काश्मीर विश्वविद्यालया काश्मीर उपत्यकायां विश्वविद्यालया महाविद्यालया च दशमासान्तरेण अद्य प्रभृति पुन प्रारभन्ते इमा शैक्षिकसंस्था चरणबद्धरीत्या प्रारप्यन्ते काश्मीर विश्वविद्यालयीय अधिकारिभि प्रोक्तं यत् संघ प्रशासनेन प्रदत्ता सर्वा दिङ्निर्देशा अन्पालनीया भविष्यन्ति अन्ते च क्रीडा वार्ता चैन्नई नगरे क्रीड्यमानायां पञ्चदिवसीय क्रिकेट निकष स्पर्धायां भारतीय द्वितीय पर्याय षड् अशीत्युत्तर द्विशतधावनांकै सह समाप्तो जात इंग्लैंड वृन्देन च क्रीडकट्रयाणां हानौ त्रिपंचाशत् धावनांका समर्जिता इंग्लैंड दलाय विजयो लक्ष द्रयाशीत्युत्तर चतुश्शतधावनांकानां वर्तते तृतीयदिवसस्य च क्रीडा समाप्ता